मणिपुरे इम्फाल नगर्या थंगल विपणि क्षेत्रे अद्य प्रातर्द्रापन्ने भीषण विस्फोटे पञ्चभि आरक्षि प्रवरै समेता षड् जना व्रणिता संजाता

इमे घटनायाममूष्यां संलिप्तान् उग्राधिक्तृन् विरुध्य कठोर पदक्षेपम् अभि याचितवन्त सन्ति दिल्ल्यारक्षि विभागस्यायुक्त अमूल्य पटनायक आरक्षिजनान् न्यवेदयत् यत्ते धैयै निदध्य्ः संयमं च धारयन्त स्वकार्य प्रति च परावर्त्तेरन् अत्रान्तरे दिल्ली उच्च न्यायालयेन अद्य उक्त घटनाया सन्दर्भे न्यायिकमन्वीक्षणम् आदिष्टमस्ति अपरतो दिल्ल्या आरक्षिविभागेन उक्त घटनाया प्रति वेदनम् अद्य गृह मंत्रालये समर्पितम् प्रधानमंत्री प्रदूषणम् प्रधानमंत्री श्रीनरेंद्र मोदी उत्तर भारतस्य विभिन्नेषु प्रान्तेषु प्रदूषणस्य चिन्ता जनिकां स्थितिम् अद्य सविस्तरं समैक्षत सहैव स देशस्य पश्चिमीय भूभागेषु वात्या जन्यां स्थितिमपि समीक्षितवान् इत पूर्वं गतदिवसे प्रधानमन्त्रिण प्रधान सचिवेन डॉपीकेमिश्रेण वायु प्रदृषणस्य नियन्त्रणार्थं दिल्ली पञ्जाब हरियाणा प्रशासनै गृद्धमाणा पदक्षेपा पुनरीक्षिता आसन्

रक्षास्त्रैज्ञापित यत् पश्चात् भारतीय सैन्य बलैरपि पाकाक्रमणानां समुचितं प्रत्युत्तरं प्रदत्तम् सैन्यतमुलेऽस्मिन् भारतीय पक्षतो न कापि जनधनक्षति सूच्यते मणिपरम विस्फोट मणिप्रे इम्फाल नगर्या थंगल विपणि क्षेत्रे अद्य प्रातर्दुरापन्ने भीषण विस्फोटे पञ्चभि आरक्षि प्रवरै समेता षड् जना व्रणिता संजाता विस्फोटेऽस्मिन् पार्श्व स्थानि नैकानि यानानि क्षति ग्रस्तानि जातानि शीर्षन्यायालय कर्णाटकविधायका शीर्ष न्यायालयेन अद्योदीरितं यत् स कर्णाटकस्य सप्तदशभि अनर्हींकृतै कांप्रेस जेडीएस दलीय विधायकै सम्बद्ध राज्य मुख्य मन्त्रिणो बी एस येदियुरप्पस्य वक्तव्योपेतं श्रव्य पटलम् अधिकृत्य सद्य प्रस्तुतां विचार याचिकां श्रोष्यति